गृह मन्त्रालय सकलानि राज्यानि केन्द्र शासित प्रदेशान् च निर्दिष्टवान् यत् तै कोविड संक्रमणस्य निरोधाय आवश्यका उपाया दृढतया प्रवर्तनीया

भवन्त अपि अस्माभि सह सुरक्षाया उपाय त्रयस्य सङ्कल्प स्वीकुर्वन्तु मुख आवरणं सन्धारयन्तु सामाजिक द्रता पालयन्त पाणि पाद च यथा समय ं प्रक्षालयन्तु औषधम् अपि सावधानता अपि इदानीं वार्ता विस्तरेण भारतम अमेरिका भारत अमेरिका देशौ प्न सबलम् उक्तवन्तौ यद देश द्वयस्य निकट तरा सहभागिता हिन्द प्रशान्त क्षेत्रे तत बहिश्च सुरक्षा समुद्धि च सबली करिष्यति अमेरिकाया रक्षा मन्त्रिणा लॉयड ऑस्टिनेन सह संभाषणाद अनन्तरं संयुक्त वार्ताहर सम्मेलनं सम्बोधयन् रक्षामन्त्री राजनाथ सिंह उक्तवान् यद् अस्मिन् हिन्द प्रशान्त क्षेत्रे समेषां कृते सुरक्षाया विकासस्य च सुनिश्चयनं भारतस्य सागर नीते अनुरूपम् एव अस्ति स्वीय वक्तव्ये ऑस्टिन उक्तवान् यत् तीव्रगत्या परिवर्तमाने साम्प्रतिके अन्ता राष्ट्रिय परिवेशे भारतम् अमेरिकाया कृते एकं महत्त्व पूर्ण सहभागि राष्ट्रम् अस्ति

पथ्चिमबंगाले प्रथम चरणात्मक मतदान संप्रति निकट तरम आलक्ष्य प्रमुख दलानां मध्ये परस्परम् आरोप प्रत्यारोपा प्रवृद्धा दूश्यन्ते असम प्रदेशेअद्य प्रधानमन्त्री श्रीनोन्द्र मोदी बोकाखाट क्षेत्रं गत्वा तत्र जनसभा संबोधयिष्यति अपरत कांप्रेस दलस्य वरिष्ठा नेत्री प्रियंका गान्धी वाड़ा अपि उर्ध्व असम क्षेत्रेष् तिम्र जनसभा उद्बोधयिष्यति गृहमन्त्रालय गृह मन्त्रालय सकलानि राज्यानि केन्द्र शासित प्रदेशान् च निर्दिष्टवान् यत् तै कोविड संक्रमणस्य निरोधाय आवश्यका उपाया दृढतया प्रवर्तनीया राज्यानां मुख्य सचिवेभ्य केन्द्रशासित प्रदेशानां प्रशासकेभ्य च सद्य लिखितेपत्रे केन्द्रीय गृहसचिव अजय कुमार भल्ला स्पष्टीकृतवान् यत् कोविड संक्रमण प्रकरणेषु पुन दृश्यमानां वृद्धिम् अभिलक्ष्य नियमानां कठोरतया अनुपालनम् परमम् आवश्यकं संजातम् अस्ति